शीय्ष गोयलः भारतेन निगदितं यत्तेन केवलं राष्ट्रहिताय क्षेत्रीय व्यापकार्थिक सहभागिता सन्धौ स्वीयं सहभागित्वं निराकृतम्

पीयूष गोयलेन प्रोक्तं यत् सदस्य देशानां प्रतः भारतेन मुख्याध्यर्थनं दृढतया उपस्थापितम् अथ च स्पष्टीक़तं यत् राष्ट्रविषये मनागपि सामञ्स्यं नैव निद्यास्यते श्रीगोयलेन प्रोक्तं यत् व्यापार हानौ संत्लनं भारतीय वस्त् सेवानां विपणौ प्रापणं स्वीयोद्योगानां संरक्षणार्थम् अन्चितायात क्रियाकलापानाम् अवरोधनं च भारतस्य प्रम्खाध्यर्थनाः सन्ति श्रीगोयलेन समाश्वासितं यत् व्यापार सन्धि विषये अन्तिमरूपेण निर्णयार्थ भारतेन कदापि शीघ्रता नैव आचरिष्यते वाणिज्योद्योग मन्त्रिणा एतदपि सूचितं यत् जापान दक्षिण कोरिया आसियान देशैः सह व्यापार सन्धिः समीक्ष्यते

सः अद्य तत्रायोज्ये दक्षिणैशिया सहकारि परिवेश कार्यक्रमस्य नियामक परिषदः पञ्चदशे मन्त्रणोप वेशने भागमावक्ष्यति केन्द्रम् लाण् केन्द्रं विदेशेभ्यः पलाण्डोः आयातस्य प्रक्रियां सरलीकर्त् प्रयतिष्यते

प्रदूषणं देशस्य उत्तरीय भागेष् प्रवर्तमाना प्रद्षणस्थितिः केन्द्रप्रशासनेन सावधानतया निरीक्ष्यते प्रधानमन्त्रिणा नरेन्द्रमोदिना गतदिने एकस्मिन् उच्चस्तरीयोपवेशने प्रदूषण स्थितिः समीक्षिता देशस्य पश्चिमीय भागेष् सम्त्थितात् चक्रवातात् उत्पन्ना स्थितिः अपि तेन समीक्षिता अनन्तरं मन्त्रिमण्डलीय सचिवेन राजीव गौवा वर्येण राष्ट्रिय राजधानी क्षेत्रे प्रदूषण नियन्त्रणार्थ विहितोपायाः तेन समीक्षिताः

बै मिण्टन चीनदेशीय मुक्त बैडमिण्टन् स्पर्धा शृंखलायां गतदिवसे फ़्ज़ौ नगर्याम् आयोजिते प्रुषाणां मिश्रित य्गल वर्गीये द्वन्द्वे भारतस्य सात्विकराज रैंकी रेड्डी चिराग शेट्टी च स्पर्धायाः दवितीय चक्रं प्रविष्टौ